अल्पसंख्यक सशक्तिकरणम् दर्य किल्पसंख्यक समुदायाना सशक्तिकरणाय प्रशासनसिपाया विधीयन्त अल्पसंख्यक कार्यमन्त्री मुख्तार अब्बास नकबी अद्य लोकसभाया लिखितोत्तर प्रत्यपादयत् यत् अधिसूचिताल्पसंख्यकाना शैक्षिकोत्थानाय प्रशासन अष्टादशोत्तरत्रिकोटि छात्रवृत्तय प्रदत्ता मन्त्रालय सबका साथ सबका विकास सि कार्यक्रमान्तर्गतमपि समध्य समानावसरान् उपकल्पयति लोकसभाया त्रितालविधेयकम् लोकसभायाम् अद्य त्रितालक विधाखि केर्चा प्रवर्तता विधाखिडस्मिन् त्रितलाकस्य निराकरणम् त्रितलाकोच्चारणम् असंवैधानिकं च प्रतिपादयित् व्यवस्था वर्तता विधास्क्रिम् उपस्थापयन् विधिमन्त्री रविशंकरप्रसाद प्रावोचत् यत् सर्वोच्च न्यायालयस्य निर्देशानन्तरमपि क्प्रथव्यि दर्शस्य विविध भागष्ट्रीप्रवर्तितास्ति सर्वोच्चन्यायालय सर्वोच्च न्यायालय अद्य क्विमादिष्ट यत् बालद्ष्कर्म प्रकरणानां शीघ्र समाधानाय मासद्वय विशाह न्यायालयान् विरच्य विशाप्तधिवक्तृणां नियुक्ति कुर्यात्

निगदित च यत् जलसंरक्षणाय समयबद्ध जलशक्ति अभियान प्रारव्धम्

एच एस प्रणयश्च स्पर्धातो बहिभूत